प्रधानमन्त्रिणा मोदिना जनान् सशक्तीकरणार्थं न्यूनतम प्रशासनम् अधिकतमं शासनमु इत्यावश्यकता सबलं प्रतिपादिता बिहारविधानसभानिर्वाचनस्य द्वितीयचाक्रिकमतदानाय प्रचाराभियानम् अनवरतं जवीयागत्या विधीयते कोविड नाइन्टीन् इति वैश्विक सङ्क्रमणं विरुध्य सङ्घर्षे अनारतं साफल्यं अधिगम्यते स्वास्थ्यलाभे परिष्कारमानाङ्कः प्रतिशतं त्रीणि चत्वारि दशमलवोत्तर एकनवतिमितो विवर्धितः इण्डियन् प्रीमियर् लीग इति स्पर्धामालिकायां ह्यः मुम्बई इण्डियन्स् इत्येतत् दलेन दिल्ली कैपिटल्स दलं नव क्रीडकानां सुरक्षापूर्वकं पराजितम् अपरस्यां स्पर्धायां सनराइजर्स हैदराबाद इत्येतत् दलं रॉयल चैलन्जर्स इत्येतत् दलं पराजयत्

अथ वार्ताः विस्तरेण प्रधानमन्त्रिणा नरेन्द्र मोदिना गतवर्षे प्लवामा आतङ्क्याक्रमणम् आलक्ष्य विपक्षीय दलानां कार्यपद्धतिविषये टीकास्त्रं प्रक्षिप्तम् तेन प्रोक्त पुलवामायाम् अर्द्धसैनिकबलानां चत्वारिंशत् वीरभटाः यदा वीरगतिं प्राप्ताः तदा एतद्दलैः न खलु दुःखम् अनुभूतम् प्रधानमन्त्री मोदी ह्यः ग़जरातस्य केवडियायां स्टेच्यू ऑफ युनिटी परिसरे समायोजितं एकता दिवस समारोहं सम्बोधयता प्रोक्तवान् यत् यदा अहं अधिकारिणां पथसश्वलनं पश्यन् आसम तदा मम मनसि द्रश्यमेकं समुद्भूतं अपि च द्रश्यमिदं पुलवामा आतङ्क्याक्रमणस्य आसीत् तेन प्रोक्तं खल् एतत् विस्मर्त्वं शक्यते यत् यदा अखिलमपि राष्ट्रं वीराणां वीरगतिं प्राप्ते सति शोकाकुलम् आसीत् तदा केचन जनाः अस्मिन् सम्मलिताः नैव आसन् अपित् एते पुलवामा आक्रमणेन स्वीय स्वार्थं साधयन्तः आसन् इति तदा विपक्षिदलानां वास्तविकं चरित्रं समेषां समक्षं द्रग्गोचरितम् श्रीमोदिना अन्ताराष्ट्रियः समुदायः आतङ्कवादं विरुध्य सम्भूय प्रतीकारार्थं प्रार्थितः प्रधानमन्त्रिणा प्रोक्तं यत् विश्वस्य शान्त्यै सम्पन्नतायै च वैश्विकसमुदायस्य ऐक्यं वर्तते अतीव आवश्यकम् इति प्रधानमन्त्रीनरेन्द्रमोदीलोकसेवायाः नागरिकसेवापरान् प्रशिक्ष्धिकारिणः प्रार्थयत् यत् ते जनान् आत्मना यूज्येयूः एवश्व उत्तरदायिनो भवन्त् इति स्टेच्यू ऑफ यूनिटी इत्यस्मात् स्थलात् दृश्यश्रव्य इति अन्तर्जालीयमाध्यमेन वार्ताक्रमे श्रीमोदिना अधिकारिणः प्रोदिताः यत् अस्माकं प्रशासनं वर्तते उत्तरदायी एवश्व युवाधिकारिभिः सामान्यजनैः सह आत्मानं योजनीयम इति तेन लोकसेवाधिकारिणः आत्मनिर्भरभारतम इति लक्ष्यं प्रापयित् लोकल फॉर वोकल इति स्वीकर्तुं आहूतम् अस्मिन्नेव क्रमे प्रधानमन्त्रिणा मोदिना देशस्य प्रथमा सामुद्रिक विमानसेवा प्रारब्धा सेवेयं स्टेच्यू ऑफ यूनिटी स्थलं अहमदाबादे सामरमती रीवरफन्ट इति नदीतटं प्रति योजयति इतः प्राक् श्रीमोदिना कोवडियायां स्टेच्यू ऑफ यूनिटी समया जलविमानस्थानकं समुद्घाटितम् अपि च केवडियातः अहमदाबादे साबरमती नदीं तटं प्रति सामुद्रिक विमान सेवा द्वारा यात्रा सम्पादिता इति बिहार विधानसभानिर्वाचनस्य द्वितीय चाक्रिक मतदानाय नैर्वाचनिक प्रचारो वर्तते चरमावस्थायाम् द्वितीय चाक्रिक मतदानाय प्रचारकार्यार्थम् अद्य वर्तते अन्तिमो दिवसः अवधेयास्पदं तथ्यमिदं यत् राज्यस्य सप्तदश जनपदानां चतुर्नवति आसनेभ्यः नैर्वाचनिकप्रचारः अद्य अवसानं याति

साम्प्रतं यावत् कोरोना सङ्क्रमणात् प्रतिशतं त्रीणि चत्वारि दशमलवोत्तर एकनवतिमिताः जनाः रोगान्मुक्ताः इति गत चतुर्विंशति होरायां ऊनषष्टिसहस्राधिकाः जनाः स्वास्थीभूताः